कांग्रेसदलीयेन् वरिष्ठ नेत्रा ज्योतिरादित्य सिंधिया वर्येण प्रधानमन्त्रिणा ग़हमन्त्रिणा च साकं मेलनानन्तरं कांग्रेसदलात् त्यागपत्रं प्रदत्तम्

विदेशमन्त्रिणा विज्ञापित धन्यवाद

भारतीय वाय्सैन्यबलस्य सी सप्तदश इत्याख्येन वाय्यानेन एते यात्रिण स्वदेशं प्रत्यानीता चिकित्साविशेषज्ञै एतेषां समेषां परीक्षणं कृतम् विदेश व्यवहार मन्त्री डॉ स्ब्रमण्यम् जयशङंकर ईरानस्थं भारतीय दूतावासं भारतीय चिकित्सकीय दलं ईरानाधकारिण प्रति च परिश्रमार्थ धन्यवादं प्राकाटयत् आकाशवाण्या सह सम्भाषमाण तेनोक्तं यत् ईरानदेशात् भारतीयान् निष्काषयित् भारतीय प्रशासनम् अस्ति कटिबद्धम्

अवसरेऽस्मिन् राष्ट्रपति रामनाथकोविन्दः उपराष्ट्रपति वैंकेया नायड् प्रधानमन्त्री नरेन्द्रमोदी च देशवासिभ्य स्वीयश्भकामना स्प्राकाशयन्

आरक्षिबलं स्रक्षाव्यवस्थाया सुदृढसम्बन्धान् अकुर्वत्

अस्मिन्नेव क्रमे मोदी प्रशासनेन गर्भावस्था चिकित्सा समाप्ति विधेयकं अस्य मासस्य तृतीयदिनांके उपस्थापितमासीत् विधेयकस्य अस्य उद्देश्यम् अस्या प्रक्रियाया गोपनीयता स्निश्चितीकरणं महिलानां गोपनीयता स्थापनं वर्तते प्रशासनेन सहायक प्रजनन प्रौद्योगिक विनियमन विधेयकमपि उररीकृतमस्ति